सर्वकारेण मई मासस्य प्रथमादिनांकात् अष्टादशवर्षादपि अधिकवयेभ्यो जनेभ्यो सूच्यौषधीकरणस्य अन्मति प्रदत्ता

एतदर्थं निवेद्यते यत् असावधानतां मा व्यवहरन्त्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

अस्मिन उपवेशने देशे कोविड संक्रमस्य स्थितिं सुच्यौषधिकरणम अभिलक्ष्य च चर्चा जाता अस्यां चर्चायां प्रधानमन्त्रिणा प्रोक्तं यत् द्वितीय वर्गस्य तृतीय वर्गस्य च नगरेष् विशेषध्यान प्रदानस्य आवश्यकता अस्ति यत्र संक्रमण द्रुतगत्या वर्धते सूच्यौषध अर्हता सर्वकारेण मई मासस्य प्रथमादिनांकात् अष्टादशवर्षादपि अधिकवयेभ्यो जनेभ्यो सुच्यौषधीकरणस्य अनुमति प्रदत्ता गतदिने प्रधानमन्त्रिण नेन्द्र मोदिन अध्यक्षतायों जातायातम् एकस्मिन् उपवेशने अयं निर्णय गृहीत अनेन सहैव स्वास्थ्यकर्मिभ्य अप्रिम पंक्तिस्थ जनेभ्यो पञ्चचत्वारिशद् वयादपि अधिकवयेभ्यो जनेभ्यो अपि पूर्ववत् सृच्यौषधीकरणस्य सौविध्यं भविष्यति सूच्यौषधीकरणस्य अस्मिन् तृतीये चरणे सूच्यौषधस्य निर्मातार सूच्यौषधस्य मासिक उत्पादनस्य पञ्चाशत् प्रतिशन्मात्राया आपूर्ति केन्द्रीय सर्वकार प्रति करिष्यन्ति सममेव शेषमात्राया आपूर्ति राज्यानि विक्रयकेन्द्राणि च प्रति कर्तु स्वतन्त्रा भविष्यति प्रधानमंत्री औषधि प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् औषधीनां महत्त्वपूर्ण चिकित्सकीय उपकरणानां च आपूर्ति निर्वाधरूपेण कर्तु औषधि उद्योगस्य महती भूमिका अस्ति स उक्तवान् यत् सर्वकारेण औषधीनां समयेन आपूर्तये भण्डारस्य परिवहनस्य सौविध्यम् अपि संवर्धितम्

इयम् आपूर्ति दिल्ली हरियाणा पंजाब राज्याना विभिन्नेष् चिकित्सालयेष् क्रियन्ते गतदिने जीवनरक्षक प्राणवायो प्रथमा मात्रा दिल्लीस्थं महा दर्गा चैरिटेबलट्रस्ट चिकित्सालयं प्रति प्रेषितम् महाराष्ट्रम देशस्य प्रथम आक्सीजन एक्सप्रेस इति गतदिने महाराष्ट्रस्य कलम्बोली क्षेत्रस्य रायगड़त आन्ध्रप्रदेशस्य विशाखापट्टनं प्रति प्रस्थित अस्मिन् रेलयाने सप्त रिक्त प्रकोष्ठा सन्ति ये विशाखापट्टन क्षेत्रात् दशाधिक एकशत मीट्रिक टन परिमित क्षमताया द्रवित प्राणवायो परिवहनं करिष्यन्ति रेलसेवां निर्वाधरूपेण प्रचालनस्य हरित क्षेत्रस्य निर्माणं कृतम् अस्ति अनेन रेलयानं स्वगन्तव्यं साधैंकदिने एवं सम्प्राप्स्यति

अवधेयास्पदम अस्ति यत् गतदिने इलाहाबाद उच्च न्यायालयेन सर्वकार पञ्चजनपदेषु पूर्णपिधानस्य निर्देशा प्रदत्ता एषु लखनऊ कान्पुर वाराणसी प्रयागराज गोरखपूर जनपदा सन्ति सर्वकारेण प्रोक्तं यत् राज्ये निर्धन जनानां जीविकाम् अभिलक्ष्य पूर्णपिधानं न करिष्यते अन्तच्चि क्रीडा वार्ता गतदिने आईपीएल क्रिकेट श्रृंखलायां चैन्नई सुपर किंग्स इत्येतद् दलेन राजस्थान रॉयल्स इत्येतद् दले पञ्चचत्वारिशत् धावनाड्कैः पराजितम्